प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिवसे फिनलैण्ड प्रधानमन्त्रिणा सना मरीनेन साकं दृश्यश्रव्य परान्तर्जालीय माध्यमेन एकस्मिन् शिखरोपवेशने चर्चा विहिता निर्वाचन आयोगेन चतुर्ष राज्येष् अथ च केन्द्रशासित प्रदेशे आगामि विधानसभा निर्वाचनमालक्ष्य ईवीएम ति यान्त्रिक मतदान यन्त्रेण सहैव मतदातृ पुष्टि पत्रस्य उपयोगार्थमपि निर्णयः गृहीतः अपि च क्रीडावार्तासु भारत ख़िण्डयोः मध्ये क्रीड्यमानायाः विंशति प्रतिविंशति क्षेपचक्रीयायाः क्रिकेट स्पर्धा मालिकायाः तृतीयायां स्पर्धायां गतदिने स्लैण्डेन अष्ट क्रीडक पुरस्सरं भारतं पराजितम्

मंत्रिमण्डलेन विंशतिसहस्र कोटिरुप्यात्मक प्रारम्भिक वित्तसाहाय्येन एतस्य विकास वित्त संस्थानस्य स्थापनायै विधेयकस्वीकृतिः प्रदत्ता केन्द्रीयमंत्रिमण्डलो पवेशनानन्तरं वित्तमन्त्री निर्मला सीतारमनः उक्तवती यत् एतत् संस्थानं विपणिभ्यः विपुलराशि संचयने दीर्घ कालिक वित्त संरक्षणे च महत्वपूर्णां भूमिकां निभालयिष्यति एवञ्च एतद्विषयिणी घोषणा वित्तमंत्रिणा वर्षस्य अस्य वित्त संकल्पनापत्रके विहिता आसीत् वित्तमंत्रिणा एतदपि प्रतिपादितं यत् एतस्मै संस्थानाय प्रारम्भिक अनुदानं पञ्चसहस्र कोटि मितात्मकं भविष्यति एतेन संस्थानेन देशे आधारभूत विकास परियोजनानां कृते दीर्घावधि कोषःनिर्मात् शक्यते भारत फिनलैण्ड प्रधानमन्त्रिणा नरेन्द्रमोदिनागतदिवसे फिनलैण्डप्रधानमन्त्रिणा सना मरीनेन साकं दृश्यश्रव्य परान्तर्जालीय माध्यमेन एकस्मिन् शिखरोपवेशने चर्चा विहिता अस्मिन् उपवेशने उभौ नेतारौ द्वि पाक्षिक सम्बन्धानां सम्पूर्ण परिदृश्यम् अभिलक्ष्य परिचर्चितवन्तौ एवमेव उभाभ्यां नेतृभ्यां क्षेत्रीय वैश्विक पारस्परिक हित सम्बन्धानां विषये मन्त्रणा विहिता आकाशवाण्याः वार्ताहरानुसारेण अनेन उपवेशनेन भविष्यत्काले भारत फिनलैण्योः मध्ये सहयोग विस्ताराय अपि साहाय्यं प्राप्स्यते प्रधानमन्त्री नोन्द्रमोदी अस्मिन् अवसरे उक्तवान् यत् उभयोः देशयोः मध्ये प्रौद्योगिकी नवाचार ऊर्जा पर्यावरण शिक्षां समेत्य नैकेष् क्षेत्रेष् प्रगाढ सम्बन्धाः वर्तन्ते निर्वाचन आयोग निर्वाचन आयोगेन चतूर्ष राज्येष् अथ च केन्द्रशासित प्रदेशे आगामि विधानसभा निर्वाचनमालक्ष्य महत्वपूर्णः निर्णयः गृहीतः

एतेन मतदातु प्टि पत्र सहायतया मतदातारः स्वीय प्रदतमतस्य पृष्टिकरणार्थं सक्षमाः भविष्यन्ति निर्वाचनायोगेन एषः निर्णयः निर्वाचनीय पारदर्शितां विश्वसनीयतां च निध्याय गृहीतः

भारतीय बैंक वित्तमंत्रिणा निर्मलासीतारमनेन स्पष्टीकृतं यत् सर्वेषां बैंक ति वित्तकोषाणां निजीकरणं न भविष्यति अथ च वित्तमंत्रिणा बैंककर्मिणां हितरक्षां निध्याय पूर्णाश्वासनं प्रदतम्